संसद वित्तसंकल्पना पत्रकाधिवेशनं सम्पन्नम् उभे अपि सदने अनिश्चितकालाय स्थगिते देशे साम्प्रतं यावत् षट्चत्वारिशत् लक्षोत्तर पंचकोटि जनेभ्यः कोविड सृच्यौषधानि प्रदत्तानि भारत इंग्लैंण्डयोः मध्ये अन्वर्तमानायाः त्रिस्पर्धात्मिकायाः एकदिवसीय क्रिकेट क्रीडा श्रृंखलायाः द्वितीया स्पर्धा अद्य पुणे नगरे समायोजयिष्यते

भवन्तः अपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

पञ्चदश मासानन्तरं प्रधानमन्त्रिणः मोदिनः इयं प्रथमा विदेशयात्रा वर्तते एञ्च यात्रेयं एतादशे काले विद्यते यदा बंगलादेश स्वकीयस्य मुक्तिसङ्ग्रामस्य सार्धशतीं आमान्यते वार्ताहरान् सम्बोधयता यात्रायाः अस्याः विषये विदेशसचिवः हर्षवर्धनश्रेंगलाः प्रोक्तवान् यत् भारत बांग्लादेशस्य स्वतन्त्रतायाः सङ्घर्षे पूर्ण सहयोगम् अकरोत् यस्मिन् हि भारतीयवीरसरििक् बलिदानमपि दत्तमासीत उभौ देशौ रणनीतिक सम्बन्धानां स्थापनायाः सार्थशतीमपि आमन्येते

अस्मिन आवसरे प्रधानमन्त्रिणा भणितं यत् भारतं बांग्लादेशाय स्थायि समर्थनं प्रदातू प्रतिबद्धं वर्तते

अवधेयास्पर्द यत् अधिवेशनमिर्द मार्चमासीय अष्टमे दिनाङ्के प्रारब्धं आसीत् एवञ्च एतस्य कृते एप्रिलमासीय अष्टमं दिनाङ्कं यावत् समयः सुनिश्चतः आसीत् राज्यसभायाः सभापतिः एम वेंक्खि नायड़ः समसूचयत् वित्तसंकल्पनापत्रकाधिवेशनान्तर्गतं समेत्य एकोन विंशति विधेयकानि पारितानि एवमेव लोकसभायाः कार्यवाहकाधिकारिणा भर्तृहरिमहताबेन भणितं यत् अधिवेशने अस्मिन् लोकसभायां अष्टादशविधेयकानि पारितानि

स्वास्थ्य मंत्रालयानुसारि विगते दिने द्विषट्टि सहघ्राधिक त्रयोविंशति लक्षजनाः सूच्यौषधानि प्राप्तवन्तः एतदन्तरा देशे कोविडतः स्वस्थतामितिः द्वि अष्ट दशमलवोत्तर पंचनवतिमिता जाता मंत्रालयानुसारि देशे साम्प्रतं यावत् द्वादश लक्ष्नाधिक एककोटिमिता जना सङक्रममात् अस्मात् स्वस्थीभूता सीबीआई केन्द्रीय अन्वेषणाभिकरणेन बैंक वित्तीय अनियमिततामभिलक्ष्य देशस्य शतं स्थानेष् स्वीय अन्वेषण प्रक्रिया विहिता

निर्वाचन तमिलनाड सर्वकारेण आगामि विधानसभा निर्वाचनमालक्ष्य महत्वपूर्ण बिन्दत्वेन चिन्ता प्रकटिता

अतः राज्यप्रशासनसम्मुखे कोविडसंक्रमणं निर्वाचनप्रक्रियां च समभिलक्ष्य बहुविधकार्याणि प्रवर्तन्ते क्रिकेट भारत इंग्लडियोः मध्ये अनुवर्तमानायाः त्रिस्पर्धात्मिकायाः एकदिवसीय क्रिकेटक्रीडा श्रृंखलायाः द्वितीया स्पर्धा अद्य पुणे नगरे समायोजयिष्यते आकाशवाण्याः स्पर्धायाः अस्याः साक्षात् विवरणप्रसारणं मध्याहे सार्थ एकवादनतः एफएमरेनबो अतिरिक्त प्रवाहिनीभिः प्रसार्यते श्रृंख लायाम् अस्यां इतः पूर्वं भारतीयवृन्द प्रथमां स्पर्धां विजित्य अग्रेसरत्वं भजते